भारतम स्वीडन सम्भाषणम प्रधानमन्त्री श्रीनरेन्द्र मोदी स्वीडन् भूपति कार्ल् षोडश ग्स्ताफश्च गतदिवसे नवदिल्ल्यां नवोन्मेष नीतिम् अधिकृत्य द्वि पाक्षिकम् उच्च स्तरीय संभाषणम् अध्यक्षितवन्तौ

सहैव तत्र विभिन्नेषु क्षेत्रेषु देश द्वय मध्यगानां लघु दीर्घ कालिक परियोजनानां समीक्षा अपि विहिता हैदराबादप्रकरणम् संसद् हैदराबादे पश् चिकित्सिकाया सामूहिक बलात्कृति हत्या प्रकरणम् अभिलक्ष्य संसद सदन द्वयेन प्रबलाक्रोश प्रकाशित दोषिणां कठोरतर दण्डाय च समाहतम् राज्यसभायाम् उक्तं निर्घण कृत्यं भ्रशं भर्त्सयद्भि विभिन्न राजनैतिक वृन्दानां नेतृभि महिला जनान् विरुध्य जायमानान् अपराधान् निरोद्ध्म् अधिनियमेष् आरक्षि प्रणाल्यां च सद्य परिष्काराणाम् आवश्यकता व्यक्तीकृता

झारखण्डम् निर्वाचनानि झारखण्डे विधानसभा निर्वाचनानां पंचमाय चरमाय च चरणाय नामांकन पत्र परावर्तनार्थम् अद्य अन्तिमा तिथि विद्यते

अत्रान्तरे राज्ये दवितीय तृतीय चरणात्मकेभ्यो निर्वाचनेभ्यो विभिन्नानां राजनैतिक वृन्दानां प्रचाराभियानानि तीव्रीभ्तानि दृश्यन्ते प्रधानमन्त्री श्रीनरेन्द्र मोदी अद्य तत्र जनसभा दवयं सम्बोधयिष्यति

बिहारस्य म्ज़फ़्फरप्र नगर वास्तव्या शिवांगी गतवर्षे जून मासे नौसेनायां प्रवेशं लब्धवती असौ डोर्नियर् विमानानां संचालनं करिष्यति

लण्डन स्था सीरिया मानवाधिकार निरीक्षण संस्था हय असूचयत् यत् रूस समर्थित शासनेन विहितेष् वाय्वाक्रमणेष् मारत् अल् नुमान नगरे इदलिब प्रान्ते अन्येष् च भागेष् नागरिका व्यापादिता एशिया क्रीडास्पर्धा त्रयोदश्या दक्षिणैशिया क्रीडा स्पर्धा मालिकाया प्रथमे दिवसे भारतेन आहत्य चतूर्दश पदकानि विजितानि तत्र त्रीणि स्वर्ण पदकानि अष्टौ राजतानि त्रीणि च कांस्य पदकानि समाविष्टानि सन्ति नेपाले पोखरायाम् आयोजितायां प्रुषाणाम् एकल ट्राइथलॉन् प्रतिस्पर्धायाम् आदर्श एम्एन्सिनिमोल भारताय आद्यं स्वर्ण पदकम् आर्जयत् इति वार्ता